श्रीमोदिना बहरीनस्य प्रधानमन्त्रिणा प्रिंस खलीफा बिन सलमान अल खलीफा इत्यम्ना साकं प्रतिनिधि स्तरीयं सम्भाषणम् आचरितम्

मध्याहे निगमबोधघट्टे तदीय अन्त्येष्टि भविष्यति प्रधानमंत्री नरेन्द्रमोदी अद्य प्रात एकादश वादने आकाशवाण्या मन की बात कार्यक्रे स्वीय विचारान् प्रस्तोष्यति

श्रीमोदिना बहरीनस्य प्रधानमन्त्रिणा प्रिंस खलीफा बिन सलमान अल खलीफा इत्यमुना साकं प्रतिनिधि स्तरीयं सम्भाषणम् आचरितम् अनन्तरं देशद्रयेन संस्कृति अन्तरिक्षं सौरसंयुति चेति विषयसम्बद्धानि सन्धिपत्राणि हस्ताक्षरितानि

असौ दिल्लीस्थे अखिल भारतीय आयूर्विज्ञान संस्थाने उपचर्यमाण अवर्तत तस्मै राष्ट्रपतिना प्रधानमन्त्रिणा अन्यैश्च नेतृभि श्रद्धाब्जलि समर्पित तस्य पार्थिववपु अन्तिम दर्शनाय अद्य प्रात भाजपा मुख्यालये स्थापयिष्यते मध्याहे निगमबोधघट्टे तदीय अन्त्येष्टि भविष्यति मन की बात प्रधानमंत्री नरेन्द्रमोदी अद्य प्रात एकादश वादने आकाशवाण्या मन की बात कार्यक्रमे स्वीय विचारान् प्रस्तोष्यति कार्यक्रमोऽयम् आकाशवाण्या द्रदर्शनस्य च सर्वाभि प्रसारण वाहिनीभि प्रसारयिष्यते सममेव प्रधानमंत्री कार्यालयस्य सूचना प्रसारण मन्त्रालयस्य प्रसारभारत्या आकाशवाण्या द्रदर्शनस्य च यू ट्यूब चैनल इति अन्तर्जालप्रसारणमाध्यमेन अपि श्रोत् शक्यते जावडेकर केन्द्रीय वन पर्यावरण जलवायु परिवर्तन मन्त्री प्रकाशजावड़ेकर अवोचत् यत् प्रशासनं इसरो इति संघटनस्य माध्यमेन देशस्य सर्वासां नदीनां मापनं विधाय नियमित रूपेण सिक्थोत्खननं सुनिश्चेष्यति कोयंबटूरे सालिम अली पक्षीप्रकृति विज्ञान केन्द्रस्य शोधार्थिभि संवादसमये प्रकाशजावड़ेकरेण इदं प्रोक्त यत् उपग्रहमापनेन विषयेऽस्मिन् साहाय्यं प्राप्स्यते बैडमिण्टन भारतस्य पीवीसिन्धः विश्व बैडमिण्टन चैम्पियनशिप् इति स्पर्धा मालिकाया महिलैकलवर्गे निर्णायकचक्रे सम्प्रविष्टा सिन्धना उपान्त्यचक्रे चीनदेशस्य चेन यू फेई पराजिता